प्रधानमंत्रिणा नरेन्द्रमोदिना अन्य राज्याणां प्रवासि नागरिकाः निवेदिताः यत् सम्प्रति कोरोना वायरस इति संक्रमणं निध्याय निज गृहं गन्तुं रेलयात्रां बसयात्रां च मा कुर्वन्तु प्रधानमंत्री नरेन्द्रमोदी कोरोना संक्रमणं निध्याय औषध समवायानां प्रतिनिधिभिः सह गतदिने दृश्य श्रव्य माध्यमेन उपवेशनं अकरोत् जनता नोवेल कोरोना वायरस इति संक्रमणस्य निराकरणाय अद्य संपूर्ण देशे जनता कर्फ्यू इति निषेधाज्ञा प्रवर्तिता भविष्यति जनतायाः जनताया अनतया इद स्वनियंत्रणाभियानं प्रातः सप्तवादनात् रात्रौ नववादन यावत् प्रवर्तयिष्यति प्रधानमंत्रिणा नरेन्द्रमोदिना गुरूवासरे उद्घोषणेऽयं विहिताऽसीत यत सर्वेपि जनाः रविवासरे स्वगृहे एवं निष्ठन्त सममेव श्रीमोदिना उक्तं यत् संक्रमण निरसनाय सहयोग प्रदातृणां आभार प्रकटनाय अपि जनाः अध्यर्थिताः प्रधानमंत्री अपील प्रधानमंत्रिणा नरेन्द्रमोदिना अन्य राज्याणा प्रवासि नागरिकाः निवेदिताः यत् सम्प्रति कोरोना वायरस इति संक्रमण निध्याय निज गृहं गन्तु रेलयात्रां बसयात्रां च मा कुर्वन्त् श्रीमोदिना प्रोक्त यत् इदानीं कीदृशी अपि यात्रा निज स्वास्थ्यस्य प्रति अनुत्तरदायित्वं द्योतयति सहक क्रिम्बिजनेभ्यः अपि समस्या उत्पादयति अमुना प्रोक्तं यत् जनसम्मर्दे यात्रया संक्रमणस्य प्रभावः प्रबलः भवति प्रधानमंत्री प्रधानमंत्री नरेन्द्रमोदी कोरोना संक्रमणं निध्याय औषध समवायानां प्रतिनिधिभिः सह गतदिने दृश्य श्रव्य माध्यमेन उपवेशनं अकरोत् श्रीमोदिना उत्पादन समेधितुं समवायाः निवेदिताः आंध्र कोरोना आंध्रप्रदेशे गतदिने कोविड नवदश संक्रमितौ द्वौ जनौ सम्मुखं आगतौ तत्र संक्रमितानां संख्या समेध्य पञ्च संजाता संक्रमितौ जनौ विजयवाडा राजमहेंद्रवरम च क्षेत्रयोः स्तः मेघालय मेघालय प्रशासनेन राज्ये प्रवासिणा प्रवेश परिसीमनस्य निर्णयः स्वीकृतः मुख्य सचिवस्य कार्यालयेन विषयेऽस्मिन् वक्तव्यं प्रदत्तं यत् मेघालये प्रवेशकतृणां सर्वेषां जनानां स्वास्थ्य परीक्षणं अतिरिच्य कोविड नवदश निरीक्षणाय नूतन प्रणाली निर्मिताः बिहार कोरोना बिहार प्रशासनेन कोरोना संक्रमणं निराकत्त् अस्य मासस्य अन्तिम दिनं यावत् सम्पूर्णराज्ये तत्काल प्रभावेन बससेवाः आहारगृहाणां च पिधानस्य आदेशः प्रदत्तः पर एतेषां आहारगृहाणां गृहेषु भोजनप्रापणसेवा यथावत् भविष्यति महाराष्ट्र महाराष्ट्र कोरोना संक्रमणस्य गतदिने द्वादश नूतन प्रकणानि समेत्य संक्रमितानां संख्या समेध्य चत्ःषष्टिः संजाता राज्यस्य सार्वजनिक स्वास्थ्य मंत्री राजेशटोपे प्रावोचत् यत् विगते अहोरात्रे इमे संक्रमिताः दृष्टाः

एकश्च मुम्बई विमानपत्तने कार्य करोति छत्तीसगढ़ छत्तीसगढ़स्य बस्तर मण्डलस्य सुकमा जनपदे गतदिने माओवादिभिः सह संघर्षे चतुर्दश सुरक्षाकर्मिणः व्रणिताः